सेनाध्यक्ष जनरल् बिपिनरावत त्वरितविजयावाप्त्यै प्रभूतसैन्यबलानाम् अपेक्षया ऊर्जस्वितानां सैन्यबलानाम् आवश्यकतां प्रत्यपा यत् भारत वेस्टइण्डीजयो मध्ये स्पर्धा त्रयात्मिकाया अन्ताराष्ट्रियैक शिवसीय क्रिकेट स्पर्धा मालिकाया प्रथमा स्पर्धा अद्य चेन्नई नगरे समायोजयिष्यते

प्रशासनेन सम्प्रति राष्ट्रिय वैद्य्तक मार्गीयश्ल्का ान प्रणाली प्रारब्धास्ति अनया प्रणाल्या समयेन्धनयो रक्षा भविष्यति अपि च गमनागमन व्यवस्थापि उत्तमा भविष्यति फास्टैग् य्तानि वाहनानि मार्गीयश्ल्का ान स्थानकेष् अवरुद्धानि न भविष्यन्ति झारखण्डम निर्वाचनम् झारखण्डे विधानसभा निर्वाचनानां चत्र्थ चरणाय श्व मत ानानि भविष्यन्ति एत र्थ सर्वविधा सज्जा प्रकल्पिता सन्ति

विपिन रावत सेनाध्यक्ष जनरल् विपिनरावत त्वरितविजयावाप्त्यै प्रभूतसैन्यबलानाम् अपेक्षया ऊर्जस्वितानां सैन्यबलानाम् आवश्यक्तां प्रत्यपा यत् अम्नोक्तं यत् राष्ट्रिय सुरक्षा व्यवस्था जटिलतां याति अतः प्रत्येकस्य नागरिकस्य सुरक्षायां सहभागिता परमावश्यकी वर्तते श्रीरावत गत िने मुम्बय्यां मनोहर पर्रिकर स्मारके सम्भाषते स्म जम्म कश्मीरम जम्मुकश्मीर लद ाखेति केन्द्र शासित प्रपेशदवये गत िने राष्ट्रिय लोक न्यायालयेष् सप्त शतोत्तर सप्तसहस्राधिक प्रकरणानि समासाधितानि आधिकारिक वक्तव्यानुसारि लोक न्यायालयेष् केन्द्रशासितप्रप्रेशदवये अष्टविंशत्यधिकैकशत न्यायपीठै एकषष्ट्यधिक चतृश्शतोत्तरैका श सहस्र संख्याकानां प्रकरणानां वा श्रवणं विहितम् असम स्थिति असमे स्थिति साम्प्रतं शनै शनै सामान्यत्वं भजते विगतास् अष्टचत्वारिंशद होरास् न काचिद् अप्रिय घटनाया सुचनाधिगतास्ति गुवाहाटी डिब्रगढ नगरपालिका क्षेत्रेष् गतपिने निषेधाजायाम् अपि शैथिल्यं प्र त्तम

बालाधिकार संरक्षणम् राष्ट्रिय बालाधिकारसंरक्षणायोगेन नागरिकता संशोधन विधेयकं विरुध्य विविधराज्येष् प्रवर्तमानेष् प्र र्शनेष् बालानां प्रयोग विषये राज्यारक्षिमहानिप्रेशकेभ्य परामर्श प्र त्त आयोगेन प्रोक्तं यत् हिंस्रगतिविधिष् बालानां प्रयोग प्रथमदृष्ट्या किशोर न्याय संरक्षणाधिनियमस्य उल्लङ्घनं वर्तते

बांग्लादेश गतशताब् स्य एकसप्ततितमे वर्ष बांग्ला शस्य स्वतन्त्रताया कतिपय वसानन्तरं पाकिस्तानसेनया तत्रत्य स्थानीयनागरिकैश्च मारितानां बुद्धिजीविनां संस्मरणे विगतपिवसे बांग्लापेशे ब्द्धिजीवि वस आमानित